जम्मूकश्मीर आरक्षि निदेशकेन आतंक निर्मूलनाय सघनान्वेषणाभियानस्य आह्वानं कृतम् भाजपादलेन कृषक कल्याणाय केन्द्रोत्थापित पादक्षेपान् जनजनेषु प्रापयितुं अभियानं प्रवर्तयिष्यते

ग़हमन्त्री अमितशाह गृहमन्त्रिणा अमितशाहेन नागरिकता संशोधन विधि विषये जनेष् भ्रान्ति प्रसारणार्थं विपक्षि दलानि आरोपितानि अद्य नव दिल्ल्यां पूर्वीय दिल्ल्या केन्द्रस्य विकासाय कड़कड़इमायां समायोजिते कार्यक्रमे अनेन प्रोक्त यत् नागरिकता संशोधन विधेयक विषये कांप्रेसस्य नेतृत्वे विपक्षिदलै देशे भ्रान्ति प्रसार्यते श्रीशाहेन भणितं यत् प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना देशे नूतना कार्यसंस्कृति समारब्धास्ति गृहमन्त्री प्रत्यपादयत् यत् प्रधानमन्त्रिणा दिल्ल्याम् अनधिकृत आवासीयपरिसरेष् निवसदभ्य चत्वारिशल्लक्षमितेभ्य जनेभ्य स्वामित्वस्य अधिकार प्रदत्त गृहमन्त्री प्रावोचत् यत् सिक्ख नरसंहार घटनाया अनन्तरमपि भूरिकाल पर्यन्त कांप्रेस प्रशासनम् आसीत् किन्त् तेन न कदापि तस्या घटनाया अन्वीक्षणं कारितम्

जम्मकश्मीर महानिदेशक जम्मूकश्मीर आरक्षि बलस्य महानिदेशकेन दिलबागसिंहेन कश्मीरे आतंक वादिनो निर्मूलयित् मार्ग पिधान पूर्वकं सघनान्वेषणाभियानस्य प्रचालनाथं समाहतमस्ति श्रीनगरे ह्य आरक्षि नियन्त्रण कक्षे उच्चस्तरीयं सुरक्षा समीक्षा सम्पवेशनम् अध्यक्षयता अमुनोक्तं यत् आरक्षि भटा विघटनकर तत्वानि विरूध्य सर्वदा सम्भय कार्याचरणं कुर्य आरक्षि महानिदेशकस्य इदं वक्तव्यं गृहमन्त्रिणा गृहमन्त्रालयस्य जम्मूकश्मीरस्य च शीर्ष अधिकारिभि साकं सुरक्षा स्थिति समीक्षायै समायोजितात् उच्चस्तरीयोपवेशनातु परं समागतमस्ति

यातायात आरक्षि भटानामन्सारेण सूच्यते यत् शैतानी नाला इत्यत्र रामसू क्षेत्रे च मार्गेष् जलपतन कारणेन स्रवलन भयात् वाहनानां गति न्यूनीकृतास्ति भाजपाकिसान मोर्चा भाजपा दलं केन्द्रप्रशासनेन कृषक कल्याणाय विहित कार्यक्रमाणां प्रसारणाय प्रतिजनपदं कृषकै समं सम्वादस्य अभियानं प्रचालयिष्यति भाजपा किसान मोर्चा इति प्रभागस्य अध्यक्षः वीरेन्द्रसिंहः प्रत्यपादयत् यत् ग्रामेष् जन जनेष् नागरिकता संशोधन विषये विपक्षिभि अपप्रचारित विषयै विपक्षिण प्रति जनानां रोषो वर्धते दलेन विपक्षिणाम् अपप्रचारस्य खण्डन पूर्वकं तल्लाभा जनेभ्य प्रतिपादयिष्यन्ते राष्ट्रपति भाषणम् राष्ट्रपति श्रीरामनाथकोविन्द प्रावोचत् यत् स्वामि विवेकानन्दस्य विचार सरणि तस्य समुत्साहश्च साम्प्रतमपि भारतीयान् जनान् सन्मार्गे सम्प्रेयति